अनेन भारतीय वायुसैन्यबलस्य शक्ति संवर्धिता रक्षामन्त्रिणा राजनाथसिंहेन विमानमिदं सम्प्राप्तम्

प्रथमा स्पर्धा वडोदरायां भारतीयसमयानुसारेण प्रात नववादने प्रारप्स्यते प्रधानमन्त्री दशहरा प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्यां दशहरा पर्वण पावनावसरे खाद्यवस्तुनाम अवव्यय निराकतृं जलोर्जसाभ्यां च संरक्षणाय जनान् अध्यार्थयत् प्रोक्त च यत् राष्ट्रपित् महात्मगान्धिन साधैकशततम जन्मजन्त्यवसरे तस्मै वास्तविक श्रद्धाञ्जलिरयं विद्यते

अनेन भारतीय वायुसैन्यवलस्य शक्ति संवर्धिता

श्भावसरोऽयं वायुसैन्यबलस्य स्थापनादिवसे विजयदशम्यां च समागत अत्रावसरे रक्षामन्त्री प्रावोचत् यदयम् ऐतिहासिकोवसर भारतक्रांसयो महत्त्वपूर्ण रणनीतिक सहभागिताया प्रतीकस्वरूपो विद्यते भारतीयवायुसेना भारतीयवायुसेनया गतदिने स्थापनाया सप्ताशीतितम वार्षिकोत्सव आमानित भारतीयवायु सैन्यबलस्य स्थापना द्वात्रिंशदधिकैकोनविंशतितमस्य खिष्टाब्दस्य अक्तूबर मासस्य अष्टमे दिनांके संजाता

समारोहं सम्बोधयन् वाय्सेनाध्यक्ष एयर चीफ मार्शल राकेश कुमार सिंह देशम् आश्वासितवान् यत् वाय्सैनिका देशस्य सुरक्षाया अखण्डताया च विषये सन्नद्वा सन्ति राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च वायुसैनिका अभिनन्दिता केन्द्रीयो गृहमन्त्री अमित शाह भारतीय वाय्सेनाया स्थापनादिवसे अभिनन्दयन् अवादीत् यत् सैन्यबलम् साहसस्य प्रतीकम् अस्ति शिवसेना राममन्दिरम् शिवसेनाप्रमुख उद्घवठाकरे केन्द्रप्रशासनं विशेषविधिप्रस्तावद्वारा अयोध्यायां रामजन्मभूमौ मन्दिरनिर्माणम् अध्यर्थितवान्

मुम्बई नगरस्थे शिवाजी पार्क प्राङ्गणे शिवसेनादलस्य त्रिपञ्चाशत् तमे स्थापनादिवस समारोहे महाराष्ट्रविधानसभानिर्वाचनेभ्य प्राक् अनुमोक्तं यत् शिवसेना भाजपादले च हिन्दृत्वम् अभिलक्ष्य निर्वाचनं सम्मुखी करिष्यत

प्रथमास्पर्धा वडोदरायां भारतीयसमयान्सारेण प्रात नववादने प्रारप्स्यते स्मृतिरन्धानायै आघातकारणात् भारतीय दलस्य समस्या संवर्धितास्ति पूजा वस्त्राकर तस्या स्थाने क्रीडिष्यति मुष्टामुष्टि मुष्टामुष्टिक्रीडायां षड्वारं विश्वविजेत् एमसीमेरीकॉम रूसदेशस्य उलान दि नगरे विश्वमहिलामुष्टामुष्टि स्पर्धायाम् एकपञ्चाशत् किलोग्रामभारवर्गे प्राग्पान्त्यचक्रे प्रविष्टा प्राग्पान्त्यचक्रे मेरीकॉम कोलम्बिया देशस्य प्रीट वालेंसिया विनया सह क्रीडिष्यति